सम्प्रति वार्ता श्र्यन्ताम्

प्रधानमन्त्रिणा श्रीनरेन्द्रमोदिना श्रीलंकीय समकक्षेण महिन्दा राजपक्षे इत्यमुना साकम् मन्त्रितं दिल्ल्याम् प्रशासनं प्रतिशतम् अष्टमितां विकास परिमितिं विधातुं कार्यपरम् इति ब्रूते वित्तमन्त्री निर्मलासीतारामन्वर्या ऑकलैण्ड क्रीडांगणे अनुवर्तमानायां द्वितीयायामेकदिवसीयायां क्रिकेट स्पर्धायां भारतं न्यूजीलैण्ड दलात् पराभूतम् दिल्ली मतदानम् दिल्ली विधानसभा निर्वाचनस्य मतदानेऽद्य वार्ता प्राप्तिं यावत् प्रतिशतं चत्श्चत्वारिशत् परिमितम् मतदानं सव्जातम्

राष्ट्रिय राजधान्यां दिल्ल्यां मतदानायोजनार्थं त्रयोदश सहस्राधिका मतदान कृटीरा निर्मिता अवर्तन्त यत्र एककोट्यधिका मतदातार स्वीयं मताधिकारं प्रयुक्तवन्त सम्प्रति समेषामपि प्रत्याशिनां भाग्यं मतपेटिकायां पिहितं जातम् प्रधानमन्त्री श्रीलंका प्रधानमन्त्री श्रीनरेन्द्रमोदी अद्य नव दिल्ल्यां श्रीलंकाया प्रधानमन्त्रिणा महिन्दा राजपक्षे इत्यम्ना सार्धं सम्भाषितवान् अत्रावसरे प्रधानमन्त्रिणा आशाभिव्यक्तीकृता यत् क्षेत्रेऽस्मिन आतंकवाद एका बृहती समस्या वर्तते तत्समाधानाय सम्भूय कार्याचरणं विधास्यते प्रधानमन्त्रिणा इदमपि आशास्तं यत् श्रीलंका प्रशासनं तमिल समृदायस्य अभिलाषां ननमेव समन्भविष्यति उपवेशन सम्भाषणा नन्तरं श्रीमोदी प्रत्यपादयत् यत् उभयो देशयो मध्ये रक्षा सरक्षा क्षेत्राणि समेत्य व्यापक विषयेष् मन्त्रणा जाता

अमेरिका भारतम् सन्ध् अमेरिकायां भारतस्य नतनो राजदत तरणजीत सिंह सन्ध न्यगादीत यत् चतर्विंशत्यत्तर द्वि सहम्र तम वर्ष यावत भारतं पञ्चाशद् खर्ब्द मूल्यात्मिकाम् अर्थव्यवस्थां विधात्म् अमेरिका देशेन साकं भारतस्य व्यापार वाणिज्य सहभागित्वं वरीयताक्रमे वर्तते ह्यो वाशिंगटन नगरे भारतामेरिका कटनीतिक सहभागिता मब्वेन श्रीसन्यो स्वागताय एक समारोह समायोजित आस्मिन्नवसरे श्रीसन्ध अवादीतृ यत् भारतामेरिकयो मध्ये असीमिता सहयोग सम्भावना वर्तन्ते अनेन प्रोदितं यत् प्रधानमन्त्रिणा श्रीनरेन्द्रमोदिना चतुर्विंशत्युत्तर द्वि सहम्र तम वर्ष यावत् भारतं पञ्चाशद् खर्बुद डॉलर मूल्यात्मिकामर्थव्यवस्थां त्रिंशदत्तर द्विसहस्र तम वर्ष यावच्च एकशत खर्बद डॉलर मुल्यात्मिकामर्थव्यवस्थां विधातुं लक्ष्यं निर्धारितमस्ति तन्मार्गे अमेरिका भारतस्य प्रमुख सहभागी वर्तते वित्तमन्त्री चेन्नयी केन्द्रीय वित्तमन्त्री निर्मला सीतारामन्वर्या प्रावोचत् यत् साधारण वित्त संकल्पना पत्रकं जनसाधारणानाम् आर्थिक विकासे परिष्कारार्थं समेषामभ्यत्थानार्थव्च विनिर्मितम् आसीत् व्यापारिक संघटनै औद्योगिक समवायै वाणिज्यिक मण्डलै वित्तकोषै आगोप संस्थाभि सहकारि संस्था सदस्यैश्च साकमद्य चेन्नव्याम एकस्मिन उपवेशने श्रीमती सीतारामन्वर्या न्यगदत् यत् यद्यपि सम्प्रति वित्त संकल्पना पत्रकेण संसदि अभ्य्पगमनीयमस्ति तथापि प्रशासनं सर्वान् सर्वसाधारणान् प्रशासनेन सहैव नेत्मीहते अमृनोक्तं यत् वित्त संकल्पना पत्रक निर्माण समये षोडश महत्वपूर्णा विन्दव विनिर्धारिता आसन् ते च ग्रामीण विकासं कृषिक्षेत्रीय विविध पक्षान् निध्याय निर्धारिता अवर्तन्त